जयशंकर विदेशमन्त्री एस् जयशंकर व्याहरद् यत् उत्तरदायि प्रतिवेशित्वेन भारत चीनयो महत्वाधायिनं कर्म देशयोर्मध्ये समुद्गूतानां समस्यानां समाधानं विद्यते एवं पारस्परिक सम्बन्ध सुदृढीकरणार्थ देशाभ्यां अनारतं प्रयतित्व्यम् विदेशमन्त्री अदय नवदिल्ल्यां समायोजिते रायसीना संवाद सम्मेलने सम्भाषते स्म अत्रावसरे अम्नोक्तं यत् भारतं न कमपि देशं दहति एतदविपरीतं आतंकवादोन्मूलनाय काठोर्येण सर्वसम्भव प्रयासान् समाचरित

शीर्षन्यायालय केन्द्रेण चत्रशीत्यधिकैकोनविंशति शत तमे वर्षे सिक्ख विरोधे प्रवर्ति तस्य उपद्रव प्रकरणस्य अन्वीक्षणाय संघटितस्य विशिष्टान्वेषणदलस्य परामर्श स्वीकृता अत्र विषये केन्द्राधिवक्ता त्षार मेहता शीर्षन्यायालयं संसूचितान् यत् विशिष्टान्वेषणदलस्य परामर्शान्ग्णं केन्द्रप्रशासनेन यथाशीघ्रमेव यथोचित पदक्रमा विधास्यन्ते

परीक्षा पे चर्चा प्रवर्तमानवर्षीयं परीक्षा पे चर्चा विषयमधिकृत्य प्रधानमन्त्रिण नरेन्द्रमोदिन कार्यक्रमे सहभागमावोढ़ं छात्रै शिक्षकै अभिभावकैश्च सोत्स्कं प्रतीक्षते

अत्र कार्यक्रमे देशस्य विविध भागेभ्य प्राय द्वि सहस्र छात्रा शिक्षका अभिभावकाश्च प्रतिभागितां आवक्ष्यन्ति परीक्षाकारणात् सम्त्पन्नां उद्विग्नतां परास्त् कथम्पायान् समाचरेय् इति विषये देशस्य प्रचिता छात्रा प्रधानमन्त्रिणं सम्भाषयिष्यन्ति